विदेशमन्त्रिणा एस जयशंकरेण कोविडमहामारीसम्बद्धानि भारतविनिर्मितानि एकलक्षस्च्यौषधानि मॉरिशसदेशाय समर्पितानि विदेश सचिवेन हर्षवर्धन श्रृंगला वर्येण निगदितं यत् भारतं सार्वभौमिक पक्षपात रहितं सत्यापन योग्यपरमाणु निरस्त्रीकरणं इत्येतेभ्य प्रतिबद्धमस्ति महाराष्ट्रे कोविड संक्रमणस्य संवर्धित प्रकरणानि निध्याय राज्ये राजनीतिक सामाजिक धार्मिक समारोहाश्च प्रतिबंधिता

अथ वार्ताः विस्तेरण प्रधानमन्त्री रक्षाक्षेत्रम् प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना देशस्य आत्मनिर्भरविनिर्माण दिशि असर्वकारीय क्षेत्रस्य महत्वपूर्णा भूमिका प्रतिपादिता प्रधानमन्त्रिणा सबलं प्रतिपादितं यत् असर्वकारीय क्षेत्रं रक्षोत्पादानां विषये अनुसन्धान शैलीसंरचनारूपे देशस्य आत्मनिर्भरता दिशि महत्वपूर्ण ं योगदानं प्रदात् शक्यते वर्षस्यास्य केन्द्रीय आय व्यय पत्रके रक्षाप्रावधानानां विषये समायोजितं उपवेशनमेकं सम्बोधयता प्रधानमन्त्रिणा श्रीमोदिना भणितं यत् रक्षामंत्रालयव्यये नवदशप्रतिशन्मिता संवृद्धि रक्षाक्षेत्रस्य आध्निकीकरणे प्रशासनस्य वचनबद्धतां प्रदर्शयति रक्षोपकरणानां आयाते निर्भरतान्यूनीकरणे बलं प्रतिपादयता श्रीमोदिना कथितं यत् देश रक्षोपकरणानां आयातकर्तापक्षेया निर्यातकरूपे प्रतिस्थपितो भवेत् तेन कथितं यत् अद्य रक्षा क्षेत्रे प्रदत्तै सौविध्यै सूक्ष्म लघु मध्यमोद्योगा स्वातन्त्रयरूपा लाभान्विताश्च भवितार श्री मोदिना एतदपि प्रतिपादितं यत् भारतेन शत महत्वपूर्ण रक्षा वस्त्नां सूचिएका विनिर्मिता या सूची नकारात्मक सूची रूपेण कथिता पर सच्याम अस्याम सम्मिलितानां उत्पादानां निर्माणे आत्मनिभरतां प्राप्य सचि एषा सकारात्मक सची रूपे परिवर्तिता स्यात तेजस विमानस्य साफल्यं प्रतिपादयता श्रीमोदिना निगदितं यत् प्रशासनेन अनेन स्ववैज्ञानिकानां अभियन्तृणां च क्षमतासु पूर्णरूपेण विश्वास प्रकटित एवञ्च रक्षाक्षेत्रे नैकानि महत्वपूर्णानि परिवर्तनानि भविष्यन्त्येव

अस्य स्वागतं मॉरीशसदेशस्य वित्तमन्त्रिणा एलन गनो वर्येण कृतम् अत्र अमुना कोविड महामारीसम्बद्धानि भारतविनिर्मितानि एकलक्षसूच्यौषधानि समर्पितानि सहैव भारतमॉरिशसयो मध्ये परस्परसम्बन्धस्य अपि च देशविकाससम्बद्धा विषया समकक्षिणा सह अनेन चर्चिता विदेश सचिव विदेश सचिवेन हर्षवर्धन श्रृंगला वर्षेण निगदितं यत् भारतं सार्वभौमिकं पक्षपात रहितं सत्यापन योग्यपरमाण् निरस्त्रीकरणं इत्येतेभ्यः प्रतिबद्धमस्ति निरस्त्रीकरण सम्मेलनस्य उच्चस्तरीयप्रखडं संबोधयता श्रंगलावर्येण प्रतिपादितं यत् भारतेन परमाण्वस्त्राणां नियमानि पूर्णतया परिपालितानि तेन कथितं यत् भारतं अंतरिक्षस्रक्षा सम्बद्धप्रकरणानां उल्लंङ्घनाय पारोस इत्यस्योपरि विधिपूरितकार्यान्वनपूरितवार्ताकरणाय सुसज्जितो वर्तते मुम्बई कोविड महाराष्ट्रे कोविड संक्रमणस्य संवर्धित प्रकरणानि निध्याय राज्ये राजनीतिक सामाजिक धार्मिक समारोहाश्च प्रतिबंधिता वहन मम्बई नगर निगमेन मासस्य अस्य विंशतितारिकायां भोजनालयेष व्यायामस्थलेष् चलचित्रस्थानकेष च कोविडोल्लंघनसम्बद्धात्मकं कार्यान्वयनं विहितम् एवञ्च मुखावरक रहित जनान् विरूध्य प्राशासनिकस्तरीया कार्यान्वयनप्रक्रिया विहिता कोविड अपडेट देशो एकादशलक्षाधिकएककोटितोऽप्यधिकजनेभ्य अद्यावधि कोरोनासूच्यौषधानि प्रदत्तनि अपि च अद्यतनीयं कोरोनास्वस्थतामानं द्वि द्वि दशमलवोत्तर सप्तनवतिप्रतिशतम् अंकितम्

पाकिस्तान एफएटीएफ वैश्विकातंकवाद रोधी समूहेन आतंकवादिशि पाकिस्तानं प्रति कार्यान्वय प्रक्रियातः रक्षीकरणार्थं पाकिस्ताने अद्य त्रिदिवसीयम् उपवेशनम समारब्धम वित्तीय कार्यान्वयन कार्य बलेन समायोजिते उपवेशने अस्मिन आतंकवाददिशि देशस्य रक्षायै उपायानां विषये चर्चा विहिता

इदम् आयव्ययपत्रकं राज्यस्य वित्तमन्त्रिणा स्रेशखन्नावर्येण प्रस्तुतम् यत् हि राज्यानां प्रथमलेखरहितम् आयव्यसंकल्पत्रकं वर्तते सावसरे स्रेशखन्ना वर्येण प्रतिपादितं यत् इद वित्तसंकल्पपत्रकम् सर्वेषां वर्गाणां समग्रविकासाय अपि च राज्यस्य आत्मनिर्भरता सम्पादनाय सर्वतोमहत्त्वपूर्ण वर्तते अपि च वितसंकल्पपत्रके विशेषेण आधारभूत विकासे जनस्वास्थ्यक्षेत्रे मानवसंसाधनक्षेत्रे अपि च कृषिसम्बद्धेषु चतुर्षु क्षेत्रेषु बलं दत्तम् अस्ति इत्यपि संसूचितम् पुद्चेरी विधानसभा प्द्चेर्या मुख्यमन्त्रिणा बी नारायणसामीवर्येण विधानसभायां बहमत अप्राप्ते अनन्तरं उपराज्यपालवर्याय त्यागपत्रं प्रदत्तम् विधानसभा अध्यक्षेण शिवकोलुथ्वर्येण उद्वोषितं यत् विधानसभायां बी नारायणसामी विश्वासमत प्राप्तदिशि असफलो जात इति अवधेयास्पदम् अस्ति यत् उपराज्यपालवर्येण तमिलसाई सौन्दराजनेन बहुमतविश्वासप्राप्त्यर्थं सायं पञ्चवादनं यावत् समय प्रदत्त आसीत् रक्षामंत्री राजनाथ सिंह रक्षामंत्रिणा राजनाथसिंहेन भणितं यत् केन्द्रीय आय व्यय पत्रके रक्षाक्रयाय पृथक व्ययव्यवस्थया देशस्य उद्योगा लाभान्विता भवेयू वर्षेस्यास्य केन्द्रीय आय व्यय पत्रकस्य प्रावधानानां तेषां प्रतिरक्षाक्षेत्रे सम्भावितप्रभावानां च विषये स्वविचारान् प्रकटयता राजनाथसिंहेन निगदितं यत् रक्षाक्षेत्रविषये सर्वकारस्य दृष्टिकोणं आत्मनिर्भरता चिन्तने आधारितमस्ति केन्द्रीयपत्रकस्यास्य प्रावधानाना उल्लेखं कुर्वता श्रीराजनाथसिंहेन स्पष्टीकृतं यत् पत्रकेिस्मन् क्षमता प्रगत्यो मध्ये महत्वपूर्ण मेलनं सम्मिलितमस्ति तेन एतदपि कथितं यत् प्रधानमन्त्रिण मोदिन दिशानिर्देशै केन्द्रशासनेन कोविड महामार्या संपीडितेभ्य क्षेत्रेभ्य सर्वाणि सौविध्यानि प्रदत्तानि

तेन अद्य द्यामाश्री जनपदस्य सिलापाधेरक्षेत्रे समायोजिते कार्यक्रमे वातीन्धनक्षेत्रीया नैका महत्वपूर्णा योजना राष्ट्राय समर्पिता प्रधानमन्त्रिणा अवसरे अस्मिन् प्रतिपादितं यत् असमप्रदेशे विकासस्य नैका सम्भावना सन्ति परं पूर्वप्रशासनेन विभिन्नक्षेत्रेषु विकास उपेक्षित श्रीमोदिना द्येमाजिअभियान्त्रिकमहाविद्यालयस्य उद्घाटनं विहितं एवञ्च सुआलकुची अभियान्त्रिकमहाविद्यालयस्य च आधारशिला संस्थापिता